जम्मू कश्मीर प्रशासनं निगदति यत् तत् राज्ये शान्ति सन्धारणार्थं प्रतिबद्धमस्ति

भारतीय ऋतुविज्ञान विभागेन गोवा राज्यस्य उत्तर दक्षिण भागेष् प्रबल वृष्टे सम्भावना प्रकटिताऽस्ति भारत चीन देशो विदेश मन्त्री एस जयशंकर न्यगदत् यत् नातिचिरमेव संसदा अभ्य्पगतं जम्मू कश्मीर सम्बद्ध विधेयकं राज्याय मद्रतरशासनं सामाजिकार्थिक विकासं च संलक्षयति तेनादीरितं यत् भारतीय संविधानस्य अस्थायि अनुच्छेदे परिवर्तन सम्बद्ध विषयोऽस्ति अथ च विषयोऽयं पूर्णतया देशस्य विशेशाधिकारो विद्यते द्वयो देशयो जनानां मध्ये सम्बन्ध सुदृढ़ीकरणार्थं शतसंख्याकानां क्रियाकलापानां समायोजनार्थं भारत चीन देशौ सहमतौ जातौ गतदिने बिजिंग नगरे चीन देशस्य विदेश मन्त्रिणा वांग यी इत्यनेन सह मेलनानन्तरं भारत चीन देशयो चत्थं सञ्चार माध्यम मञ्चं सम्बोधयता विदेशमन्त्रिणा एस जयशंकरेण एतत् प्रतिपादितम् डॉ जयशकरेण प्रोक्त यत् क्लिश मानसरोवर यात्राया विस्ताराय चीनपक्षत परामर्श प्रदत्त अपि च भारतेन परामर्शोऽयं भृशम् अभिनन्दित

एकस्याम् अधिकारिक विज्ञप्त्यां निगदित यत् बांदीपोरा बारामूला कुपवाड़ा तरेगाम सोपोर कुलगाम पुलवामा नगराणि समेत्य कतिपय स्थलेष् बृहदसंख्यायां ईदपर्वण नमाजेति प्रार्थना अन्ष्टिता जम्मूक्षेत्रेऽपि मस्जिदेष् वृदसंख्यायां जनामाजेति प्रार्थना अनुष्ठिता यद्यपि श्रीनगरस्य हिंस्रघटनाशंकित क्षेत्रेष् विधिव्यवस्थां संधारयित् सम्चित प्रतिबन्ध प्रवर्तित आसीत् जम्मू कश्मीरस्य राज्यपाल जम्मू कश्मीरस्य यात्रां विधाय तत्रस्य यर्थाथस्थितिम अवेक्ष्य वक्तव्यं दातुं कांप्रेस दलस्य वरिष्ठो नेता राहुल गांधी जम्मू कश्मीरस्य राज्यपालेन सत्यपालमलिकेन प्रोक्त गतदिने द्रदर्शनेन सह एकस्मिन् विशिष्ट साक्षात्कारे श्रीमलिकेन प्रोक्त यत् राज्ये विगतक्रसप्ताहात् स्थिति शान्तिपूर्णा वर्तते राज्यपालेन केषांचन पश्चिमीय देशानां सब्चारमाध्यमानां वृत्तानि प्रत्याख्यातानि एतेषु वृत्तेषु व्याहृतं यत् जम्मू कश्मीर स्थिति सामान्या नद्यस्ति सप्तत्यधिकशितानुच्छेदस्य निरसनस्य यर्थाथताम् अंगीकृत्य विकासपथि अप्रेसर्त् तेन युवजना अध्यर्थिता राज्यपालेन प्रोक्तं यत् सञ्चारमाध्यमानि विरूध्य प्रवर्तिता प्रतिबन्धा भूयोऽपि किञ्चित् कालात् प्रवर्तिष्यन्ते तेन प्रोक्त यत् उपत्यकास् आतितम् उत्पादयित् पाकिस्तानेन अन्तर्जालं सामाजिक सब्चार माध्यमानि च शस्त्रास्त्ररूपेण प्रय्ज्यन्ते जावडेकर भोपालम् सूचनाप्रसारणमन्त्री प्रकाशजावडेकर गतदिने मध्यप्रदेशस्य इन्दौरनगरे वार्ताहरान् असूचयत् यत् सप्तत्यधिक त्रिशतानुच्छेदस्य अपाकरणं जम्मूकश्मीरनिवासिभ्य न्यायोचितम् वर्तते सम्प्रति जम्मू कश्मीरनिवासिभि देशस्य अन्यराज्यानि एव शिक्षादि क्षेत्रेष् आरक्षणादि सामान्याधिकारा प्राप्स्यन्ते तेन एतदपि प्रोक्त यत् कांप्रेसदलेन पञ्चसप्तति दिवसेस् केवल अध्यक्षपदस्य चयन कृतं अपरत्र भाजपेति दलेन देशविकासाय पञ्चसप्तति निर्णया स्वीकृता

गतदिने तमिलनाड्राज्ये भेल्लौर स्थले आयुर्वेद चिकित्सकीय महाविद्यालयस्य उद्घाटनावसरे केन्द्रीयायुष्पाज्यमन्त्रिणा श्रीश्रीपादयशो नायकेन एतत् समुदीरितम्